भारते द्वादश कोटि प्रायेभ्य जनेभ्य कोविड सूच्यौषधानि वितरितानि

पश्चिम बंगाले विधानसभा निर्वाचनस्य पञ्चम चरणस्य मतदानं शांतिपूर्वकं प्रचलति सुप्रसिद्ध तमिल अभिनेता विवेक चेन्नई नगर्यां निधनमुपगत आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य सायं चेन्नव्या एम ए चिदम्बरम स्टेडियम त्ति क्रीडाङ्गणे मुम्बई डियंस दलस्य साम्मुख्यं सनराजिर्स हैदराबाद दलेन साकं भविष्यति

एतदर्थं निवेद्यते यत् असावधानता नैव आचरन्तु

वार्ताः विशदीकृत्य कोविड अद्यतनम् केन्द्रीय स्वास्थ्य परिवार कल्याणमन्त्री डॉ हर्षवर्धन कोविडमहामारीं नियन्त्रयितुं सूच्यौषधस्य समानरूपेण समुपपादने बलं प्रदत्तवान्

डॉ हर्षवर्धनेन सर्वेषां कृते एक ंसुच्यौषधमिति विषये आर्थिक सामाजिक परिषद मन्त्रिस्तरीयं विशेष सम्पवेशनं संबोधयता प्रोदितं यत् वैश्विक समृदायस्य समक्षम औषधोपपादनस्य सामर्थ्यस्य उपलब्धताया वितरणस्य च विकराल समाह्वानमस्ति अमना प्रोक्त यत् कोविड सूच्यौषधस्य वितरणे वैश्विक सहयोगस्य नैयून्येन निर्धन देशा प्रभाविता भविष्यन्ति डॉ हर्षवर्धनेन सर्वेषां देशानां मध्ये सृष्ठतर सामंजस्य विधानं सहयोगञ्च अनुरोधयता निगदितं यत् कोरोना विषाणो नूतन प्रसार लहरी सजवं विकसति अत अस्य समापनाय अन्ताराष्ट्रिय स्तरे निभालनम् अभिज्ञानं च कर्तू विभिन्न देशानां मध्ये सहयोग आवश्यक अस्ति डॉक्टर हर्षवर्धन नूतनाम् समस्यामिमां प्रभावितया समाधातुं समयबद्ध सूचनाया आदान प्रदानयो आवश्यकतायामपि बलं प्रायच्छत् देशे कोविड नवदश संक्रमण समस्याम् अल्पीकर्त् विहित प्रयासानां चर्चां कुर्वन् स्वास्थ्यमंत्री प्रत्यपादयत् यत् भारतं महामार्या साकं योधने वैश्विक स्तरे प्रथम पंक्तौ वर्तते अमुना प्रोक्तं यत् सूच्यौषध द्वयस्य आपद्पयोग अनुमत अस्ति विंशति सूच्यौषधानि विचाराधीनानि सन्ति अमना प्रोदित यत् प्रशासनं निज नागरिकेभ्यः सूच्यौषधस्य उपपादने प्रतिबद्धमस्ति

भारतेन साम्प्रतं यावत् द्वादश कोटितोऽप्यधिकानि कोविड सूच्यौषधानि वितीर्य विश्वे एका कीर्तिमत्ता स्थापितास्ति स्वास्थ्य मंत्रालयेन प्रतिपाद्यते यत् विगत चतुर्विंशति होरासु चतुसहस्राधिक त्रिंशल्लक्षाधिका जना कोविड सूच्यौषध प्रदानेन सम्पकृता सन्ति अस्मिन्नवसरे समस्ते देशे कोविड महामार्या द्वि नवत्यूत्तर षट् शताधिक चतृखिंशत् सहम्रोत्तर द्वि लक्षाधिकानि प्रकरणानि पुष्टिङ्गतानि सन्ति

देशे ह्य एव अनया महामार्या एक चत्वार्रिशदत्तर त्रिशताधिक एक सहस्रमिता संक्रमिता जना मृत्युमपगता सुच्यन्ते अनेन साकमेव देशे संक्रमणेन अनेन पञ्चसप्तति सहस्रोत्तर एक लक्षाधिका जना मृत्युम्पगता सन्ति वर्तमान काले देशे स्वस्थीभूयमानानां परिमिति अपचीय प्रतिशतं दशमलवोत्तर द्वि त्रि अधिक सप्नाशीति मिता संजातास्ति मंत्रालयेन प्रतिपादितं यत् विगत चतूर्विंशति होरास् सपादैक लक्ष प्राया जना कोरोना संक्रमणत स्वस्थीभूता सन्ति अनेन साकमेव साम्प्रतं यावत् संक्रमणत आहत्य षड्विंशति लक्षाधिक एक कोटितोऽधिका जना स्वस्थीभूता सन्ति अस्मिन् समये देशे नव सप्ति सहस्रोत्तर षोडश लक्षाधिका जना उपचार्यमाणा सन्ति भारतीय आयुर्विज्ञान अनुसंधान परिषदा आईसीएमआर त्विनया प्रोक्तं यत् विगत चतुर्विशति होरासु विभिन्न प्रयोगशालासु पञ्च नवति सहस्राधिक चत्दर्श लक्षाधिकानां संक्रमितानां कोविड परीक्षणमस्ति जातमु अनेन साकमेव देशे साम्प्रतं यावत् ऊनपञ्चाशल्लक्षाधिक षड्विंशति कोट्यधिकानि कोविड परीक्षणानि सन्ति विहितानि प्रधानमंत्री क्म्भ प्रधानमन्त्री नरेन्द्र मोदी कोविडमहामारीम् आलक्ष्य कृम्भस्नानं प्रतीकात्मक रूपेण आयोजनाय जनान् अभ्यर्थितवान् स्वामी अवधेशानन्दगिरिणा सह दौरभाषीय संभाषणानन्तरम् अन्रोधोऽयं प्रधानमन्त्रिणा कृत तेनोक्तं यत् अनेन निर्णयेन महामारीं विरूध्य संघर्षे संबल मिलिष्यति हिन मोदिना कोविडसंक्रमितानां साधूनां स्वास्थ्यविषये चर्चापि विहिता सहैव प्रशासनेन सह सहयोगाय साधुभ्य साधुवादाश्च सम्प्रेषिता

संचाररोधादेश कोविडमहामार्या प्रकोपगति दृष्ट्वा देहलीसर्वकारेण सप्ताहान्त पूर्णावरोधस्य प्रायश सम्पूर्णेंऽपि राष्ट्रियराजधानी क्षेत्रे अन्पालनं क्रियते श्क्रवासर रात्रि दशवादनत सोमवासर प्रात पञ्चवादनं यावत् अयं संचारारोध स्थास्यति विधानसभा निर्वाचनम् पश्चिमबंगाल विधानसभा निर्वाचनस्य पंचमचरणीय मतदानम् प्रात सप्तवादनत सायं सार्धषड् वादनं यावत् प्रचलति

सहैब लोकसभाया क्षेत्रद्वयाय मध्यावधि निर्वाचनमपि प्रचलति यस्मिन् आन्ध्रप्रदेशस्य तिरूपति कर्णाटकस्य च बेलगाम ति निर्वाचनक्षेत्र द्वयम् समाविशति सार्धत्रिवादनं यावत् पश्चिमबंगाले एकोनसप्तति दक्षमलव द्वि सप्त प्रतिशतमितं मतदानं समजायत प्रचाराभियानं च अवशिष्टानां चरणानां कृते द्रतगत्या प्रचलति यत्र बंगालस्तरीयै नैकै नेतुभि सह केन्द्रीयनेतारश्व सोत्साहं प्रचाराभियाने सन्नद्वा सन्ति वरिष्ठो भाजपादलनेता नरेन्द्रमोदी पश्चिम वर्धमानजनपदे असनसोल नामके स्थाने जनसभा संबोधितवान्

गृहमंत्री अमितशाह च आमडांगा निर्वाचनक्षेत्र पदयात्रां कृतवान् क्षेत्रमिदं उत्तरचौबीस परगना मण्डलान्तर्गतमस्ति

अद्य सायं मम्बई डियंस दलस्य प्रतिस्पर्धा सनरा विर्स हैदराबाद श्ति दलेन सह चेन्नई नगरस्थे एमए चिदम्बरम् क्रीडाङ्गणे भविष्यति